केन्द्रीय प्रत्यक्ष करपरिषदा प्रोक्तं यत् अष्टादशोत्तरद्रिसहस्रात् ऊनविंशाधिक द्विसहस्रतम ख्रीस्ताब्दं यावत् निर्धारण वर्षावधौ कोट्यधिपति करदातृणां संख्या प्रतिशतं विंशतिमितं समेध्य एकोननवत्यधिक षट्शतोत्तर सप्तनवति सहस्रमिता संवृत्ता भारत दक्षिणाफ्रीका देशयोर्मध्ये अनुवर्तमानायां क्रिकेट निकष स्पर्धा शङ्खलायां द्वितीय निकष क्रीडायाः त्तीये दिवसेऽद्य पृणे नगरे दक्षिणाफ्रीकादलं स्वीय प्रथमपर्याये दण्डेन क्रीडितं पनरारप्स्यते मोदी शी मेलनम् प्रधानमन्त्री नरेन्द्रमोदी चीन राष्ट्रपतिः शी जिनपिंगश्च भारत चीनदेशयोर्मध्ये अनुवर्तमानस्य अनौपचारिक शिखरोपवेशनस्य द्वितीये दिवसेऽद्य प्नरेकदा संभाषणम् अनुष्ठास्यतः उभावपि नेतारौ अद्य प्रातः प्रायः दशवादने ताज फिशरमन्स् कोव् इत्याख्ये वसतिगृहे मेलिष्यतः विदेश सचिवः विजय गोखले असुचयत् यत् गतवासरे उभयोः नेत्रोः मध्ये देशद्वयस्य पारस्परिक हितविषयेष् विस्तरेण परिचर्चा जाता

इतः वर्षैकपूर्व संख्येयं चत्शत्वारिशदधिक त्रिशतोत्तरैकाशीतिसहस्रमिता अवर्तत

ह्यः मुम्बय्याम् एकं वार्ताहरसम्मेलनं सम्बोधयन्ती श्रीमती ईरानी अकथयत् यत् कांप्रेस दलस्य नेत्रा राहुल गांधिना एतद वक्तव्यं यत् तस्य दलस्य नेतारः किमर्थ देशस्य छविं ध्लिसात्कत् प्रयासरताः सन्ति सा उक्तवती यत् महाराष्ट्रस्य जनताः आगामिष् विधानसभानिर्वाचनेष् कांप्रेस् दलाय एतदर्थं सम्चित प्रत्युत्तरं प्रदास्यन्ति

उत्तस्प्रदेश मुख्यमन्त्री योगी आदित्यानाथः गतदिवसे कालका जींद नारायणगढ़ सोनीपतेष् नैर्वाचनिक्यो जनसभाः समबोधयत् कालकायां जनान् सम्बोधयन् असौ अवादीत् यत् भाजपा दलं सकारात्मक धिया प्रतिस्पर्धते परञ्च कांप्रेस् नकारात्मक भावेन परिपूर्णमस्ति रॉबर्ट वाड्राम् आक्षिपन् श्री योगी अवादीत् यत् प्राक्तनेन कांप्रेस् शासनेन हरियाणायाम् अन्येषां हिताय भूविक्रयणं कृतम्

गाजियाबादस्य वायसैन्य विमान पत्तनस्य निकटस्थात नागरिक विमानस्थात्रात् नवासनसंवलितं विमानमिदमैदं प्राथम्येन प्रस्थितम् क्रिकेट् भारत दक्षिणाफ्रीका देशयोर्मध्ये अनुवर्तमानायां क्रिकेट् निकष स्पर्धा शृङ्खलायां द्वितीय निकष क्रीडायाः तृतीये दिवसेऽद्य पुणे नगरे दक्षिणाफ्रीकादल स्वीय प्रथमपर्याये दण्डेन क्रीडितुं पुनरारप्स्यते